केन्द्रप्रशासनम् रवि सस्यानां कर्तनं ग्रीष्मर्त् सस्यानां च वपनं स्चारुतया स्निश्चेत्ं प्रशासनेन नैके पदक्रमा विहिता कोरोना महामारि संकटमालक्ष्य देशे प्रवर्तितात् जन सञ्चारावरोध कारणात् कृषका मा स्म भूवन् समस्याग्रस्ता

अत्रान्तरे कृषि कार्येष् उपय्ज्यमानाना उपकरणानां सम्बद्ध सेवानां च आपणानि यथापूर्व प्रकल्पयित्रं अपि प्रशासनेन समादिष्टम् जम्मूकश्मीर केन्द्रप्रशासनेन जम्मूकश्मीरे सर्वेष् अपि प्राशासनिक पदेष् कर्मरतेभ्य अधिकारिभ्य केन्द्रशासिते प्रदेश आवास प्रदान पात्रतां स्निश्चेत्ं आदेश प्रख्यापित

इदमित्थम् तत्र पञ्चदश वर्षतोप्यधिक वर्षेभ्य निवसन्तो जना अपि जम्मूकश्मीरे आधिकारिकरुपेण आवासाधिकारं प्राप्स्यन्ति

अतः प्नरेकवारं सामूहिक प्रयासस्य प्रदर्शनार्थ देशवासिन प्रधानमन्त्रिणा समाहता श्रीमोदिना अध्यर्थितं यत् श्व अर्थात् अप्रैल पञ्चमे दिनांके रात्रौ नववादने नवमिनटावधये निजावासानां विद्य्त्पिधाय दीप प्रज्वालन पूर्वकं देशस्य समूहात्मिकां शक्तिम् सप्रदर्शयन्त् भवन्तो देशवासिन

विश्व खादय कार्यक्रम वर्ल्ड फ्र्ड प्रोग्राम इति विश्व खाद्य कार्यक्रमो ब्रूते यत् विश्वस्मिन्नपि विश्वे प्रसृतात् कोरोना महामारि कारणात् वैश्विकस्तरे खाद्यापूर्ति श्रृंखलाया अध्नावधि नास्ति तावद्दषप्रभाव परं खादयाप्र्ति श्रंखला प्रबन्धका विचलिता भवन्ति चेत् स्थिति अनियन्त्रिता भविष्यति नास्त्यत्र सन्देह

अत्र क्रमे सर्वेष्वपि प्रदेशेष् प्रधानमन्त्री गरीब कल्याण योजनाया प्रवर्तनार्थमपि प्रयासा जवीयगत्या विधीयन्ते कोरोना विगतेष् चत्र्विशति होरास् देशे एकाधिक षट्शतं नूतनानि कोरोना प्रकरणानि समक्षमागतानि एवं संक्रमणेन द्वष्प्रभावितानां संख्या आहत्य देशे ऊनत्रिंशत् सहस्रं सम्प्राप्ता स्वास्थ्य परिवार कल्याण मन्त्रालयान्सारि विगतेष् चत्र्विंशति होरास् संक्रमण द्ष्प्रभाविता द्वादशजनाश्च मृत्य्म्पगता एतदतिरिच्य उक्त मन्त्रालयेन देशे प्रवर्धमानस्य कोरोना संक्रमणस्य प्रसारं नियन्त् नैके परामर्शा प्रख्यापिता सन्ति